प्रशासनेन प्रति ादितं यत् लाण्ड्रनां मूल्यो चयनं अस्थायी स्थितिश्च गहनावधाना वर्तते

प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना आतंकवादं सम्मुखीकर्त्यू बह् क्षीय सहयोगाहवानं कृतम् संय्क्त राष्ट्र महासभाया चत्स्सप्तति तमीयो वेशने आतंक सदृग् वक्तव्येष् विश्व नेतृणाम् वेशने तेनोदीरित यत् द्वि ाक्षिक क्षेत्रीय आधारभूत सरंचनाया थक् आतंकवाद विरूद्धय गो नीय सूचनाना मादान प्रदानम् आवश्यकं वर्तते विदेश मन्त्रालयीय सचिव ए गीतेश शर्मा न्यूयॉर्क वार्ताहरै सम्वदन् प्रोक्तवान् यत् आतंकवादिभ्य धन आय्ध सामग्री सौविध्यं नैव भवितव्यम्

प्रधानमन्त्रिणा भणितं यत् भारतेन ऋत रिवर्तनदिशि बहव प्रयासा विहिता हय न्यूयॉर्क संयुक्त राष्ट्र ऋत् रिवर्तन शिविरो वेशने तेनोक्तं यत् वैश्विक संकटम् अधाकरणाय भूरि प्रयासा उधायाश्च अप्रेक्षिता तेन जल संसाधन विकासाय जल जीवन मिशनस्योल्लेखमाप कृतम् तदनन्तरं प्रधानन्त्रिणा स्वास्थ्य कवरेज इति समावेशन कार्यक्रमे राष्ट्र महासभाया उच्चस्तरीयो वेशनम संबोधितम्

प्रोक्तञ्च यत् स्थितौ दृष्टि सन्धार्यते वक्तव्यिमदं उ भोक्ता खादय वितरणमन्त्री रामविलास ासवान प्राकाशयत् असौ अद्य नवदिल्यां वार्ताहरै सम्भाषते स्म महाराष्ट्रे मध्यप्रदेश च द्रा न्ना जलौघस्थिति अम्ना सलाण्ड्नैयून्ये एतत् मूल्यवर्धने च प्रम्खकारणत्वे प्रख्यापिता रिजर्व बैंकम् रिजर्व बैंकेन ञ्जाब एण्ड महाराष्ट्र कॉ रेटिव बैंक लिमिटेड नामाख्यं बैंकं प्रति दिशानिर्देशा प्रदत्ता तदन् न्यासकर्तार बैंकात् सहस्ररूप्यक धन निष्कासनाय एव अनुमता आयुष आय्ष मन्त्रिणा श्री द नाइकेनादय भणितं यत् तदीय मन्त्रालयेन आय्ष्मान भारत योजनान्तर्गतं वर्तमान आगामिवर्षाय च द्वि शतोत्तर चत्स्सहस्र स्वास्थ्य केन्द्राणां स्था नोददेश्यं निर्धारितम् तेन भणितं यत् चत्ः स अञ्चाशदृत्तर सप्तदश शत केन्द्राणि स्थापितानि एतदर्थ सार्धैकशत कोटि रूप्यकाणि अन्शंसितानि श्री नाइकेनोदीरितं यत् त्रीणि स्वास्थ्य केन्द्राणि राजस्थान ओडिसा झारखण्डानि च स्थापितानि

अमुनोक्तं यत् दलयोर्मध्ये संय्ति विस्तृत वितरणं महाराष्ट्रस्य म्ख्यमन्त्रिणा देवेन्द्र फडणवीसेन यथाशीघ्रं संघोषयिष्यते जम्मू कश्मीर जम्मूकश्मीर आय्ष्मान भारत प्रधानमन्त्री जन अरोग्य योजनान्तर्गतं देशे सर्वाधिक स्वर्ण त्र प्रसारणाय प्रथमं राज्यं संवृत्तम्